सुचना प्रसारण मन्त्रिणा प्रकाशजावड़ेकर महोदयेन भारत शिधान आन्दोलनस्य समर्थनाय वि क्षिदलानि कट्वालोचितानि

कोरोनात राष्ट्रिया स्वस्थता मिति अ चीय चत्र्णवति दशमलव ंच नव रिमिता समंकिता देशे निवेशदिशि भारत कतर देशौ विशिष्ट कार्यान्वयन बलस्य संगठनाय निर्णयं विहितवन्तौ

कोरोना महामारिकालावधौ चरिष्ण्तन्त्रेति प्रौद्योगिकि माध्यमेन समाजस्य निर्धनवर्गीया वंचितवर्गस्थाश्च लाभान्विता भवितार तेनोक्तं भारतस्य चलभाष प्रविधे प्रयोगप्रस्सरं जगत दीर्घकालिकम् कोरोनासूच्यौषधीकरणस्य अभियानम् आरब्धम् श्रीमोदी अद्य इंडिया मोबाइल कांग्रेस इत्येतस्य चत्थं संस्करणं सम्बोधयति स्म असौ अवदत् यत् चरिष्ण्तन्त्रप्रविधे साहाय्येन लक्षाधिका भारतीया नैककोटि डॉलरमुद्राया लाभम् प्राप्तवन्तः एतत्साहाय्येन मुद्रारहितं च क्रयविक्रयणं सम्भवं संजातम् द्रसंचार राणां उ करणानां उत् दने भारतं जगत केन्द्रत्वेन विनिर्मातं प्रधानमन्त्रिणा देशवासिनः समाहताः अत्र दिशि फाइव जी इति उन्नतस्तरीयं प्रणालिनिर्माणस्य लक्ष्यं समयबद्धरीत्या अवाप्त् सम्भूय कार्याचरणार्थ प्रधानमन्त्री अध्यर्थयत् असौ सबलं न्यगादीत् यत् चरिष्णुतन्त्राणां उत्पादने भारतेन महती सफलता अधिगता इत्थं राष्ट्रं चलभाषनिर्माणदिशि म्ख्यकेन्द्रत्वेन अग्रत्वं भजमानम् अस्ति अमुनोक्तं यत् प्रशासनेन विहितेन एतदृत् दनसम्बद्धन प्रोत्साहनयोजनामाध्यमेन द्रसंचारक्षेत्रं प्रोत्साहनं अवाप्स्यति अथ प्रशासनं अग्रिमे वर्षत्रये प्रत्येकस्मिन् ग्रामे उच्च सम्पर्क गतियुतस्य सम्पर्क सौविध्यस्य उप्लम्भनार्थ वर्तते प्रतिबद्धम् एतद्दिशि जवीयगत्या कार्याणि विधीयन्ते

नवदेल्ल्यां वर्ताहरै सह सम्भाषमाण असौ प्रावोचत् यत् वि क्षिदलानि कृषकेष् भ्रमं उत्पादयन्ति अपि च कृषकाधरितां राजनीतिं कुर्वन्ति अत्रावसरे अमूना उक्तं यत् कृषिविधेयकं कृषककल्याणाय अस्ति

अत्रावसरे असौ न्यगादीत् यत् त्रिंशत् सृच्यौषधानि विकासस्य विभिन्नचणेष् विदयन्ते अपि च दवे सूच्यौषधे विकासस्य अन्तिमावस्थायां स्त

रमिदानीं वैज्ञानिकानां अन्मतिप्रदानानन्तरमेव कार्यमिदं आरप्स्यते नवदिल्यां वार्ताहरान् सम्बोधयन् स्वास्थ्यमन्त्रालयीय सचिव राजेशभ़षण न्यगादीत् यत् व्या कस्तरे कोरोना सूच्यौ धस्य निर्माण प्रक्रियाम् आलक्ष्य सर्वविधा सज्जताः प्रप्रिताः सन्ति अप्रि च यथाशीघ्रमेव प्रत्येकम देशवासी सूच्यौषधं प्राप्न्यात् इति ध्यात्वा सर्वविधं प्रबन्धनं चापि विहितम् अस्ति ध्येयमस्ति यत् सीरम इन्स्टीट् ऑफ इण्डिया अथ भारत बायोटेक इति औषध निर्मात संस्थानदवयेन देशे निर्मितस्य कोरोना सूच्यौषधस्य आ ात्प्रयोगार्थम् अनुमति याचिता अस्तित एतदर्थ सम्बदधविभागे उक्तसंस्थानदवयेन ांजीकृतम् अस्ति

साम्प्रतं त्र्यशीति सहस्रोत्तर त्रि लक्ष संख्याका जना सन्ति संक्रमणग्रस्ताः इत्थं संक्रमितानाम् प्रतिशतता त्रि दशमलव नव षट् रिमिताः जाता राष्ट्रिया स्वस्थता मितिश्चा अ चीय चतुर्णवति दशमलव च नव रिमिता समंकिता देशे चिकित्सो चारानन्तरं स्वस्थतां गतानां कलसंख्या ऊनाशीति सहस्रोत्तर एकनवतिलक्ष मिता संजाता विगते अहोरात्रे प्रायेण सप्त षष्ट्यधिक च शतोतर षड़विंशति सहस्रं महामार्या नवप्रकरणानि ्ष्टिंगतानि

तत्रैव गतास् चत्र्विंशतिहोरास् नवत्रिंशत्सहस्रं सक्रमिता स्वास्थ्यलाभम् अवाप्य गृहं प्रत्यवर्तिता

एवं अद्यावधि प्रारू रीक्षणस्य क्ल संख्या आहत्य अष्टाशीते लक्षाधिक चतुर्दश कोटितोपि अधिका संवत्ता

एतद्ददेश्यं कतरदेशस्य निवेश अधिकारिभ्य भारते सरलतया निवेश सौविध्यस्य प्रदानम् अस्ति प्रधानमन्त्री नरेन्द्रमोदी अद्य कतरदेशस्य प्रम्खेन तमीम बिन हमाद अल थानी इत्यमुना समं द्रभाष माध्यमेन सम्भाषणम् अकरोत् अत्रान्तरे भारते ऊर्जाक्षेत्रे व्यवधानरहितं निवेशं अवलम्ब्य विस्तृत रिचर्चा समन्ष्ठिता सममेव देशद्वयोर्मध्ये प्रवर्तमाना निवेशस्विधा अथ ऊर्जा स्रक्षादि विषयाश्चापि चर्चिता प्रधानमन्त्री ट्वीट् सन्देशे अवादीत् यत् कतरदेशस्य प्रधानेन समं रिचर्चा सकारात्मिका सुखदा च अवर्तत अत्रांतरे मया कतरस्य राष्ट्रियदिवसम् उपलक्ष्य तददेशप्रम्ख वर्धापित असौ अचकथत् यत् कतरदेश भारतस्य ऊर्जा क्षेत्रे महत्वास दां भूमिकां निभालयति सेना प्रमुख भारतीय सेनाप्रमुख एमएमनरवणे श्व संयुक्त अरब अमीरातस्य अथ सउदी अरब यात्रायां प्रस्थाष्यति अस्यां यात्रायाम् अयं स्वसमकक्षेण वरिष्ठ सैन्य अधिकारिभि च सह चर्चा विधास्यति इयं ऐतिहासिकी यात्रा मन्यते असौ प्रथम भारतीयसेनाप्रमुख अस्य देशद्वयस्य यात्रां प्रति गमिष्यति यात्राया प्रथमे दिने असौ भारत संयुक्त अरब अमीरातदेशयो रक्षाक्षेत्रसम्बद्धानां मार्गाणां उन्नयनसम्बद्धविचारान् आलक्ष्य गोष्ठीं सम्बोधयिष्यति यात्राया च अन्तिमचरणे दिसम्बर मासस्य ट्रयोदशे दिनांके सउदी अरब राज्ययो नैका गोष्ठय सम्बोधयिष्यति अत्रांतरे असौ देशयो स्रक्षा प्रतिष्ठानस्य वरिष्ठ अधिकारिभिश्च सह मन्त्रणां समाचरिष्यति क्रीकेट भारतम् ऑस्ट्रेलिया देशं चान्तरा विंशति प्रतिविंशति क्रिकेट् क्रीडाया अन्तिमा स् र्धा सम्प्रति सीडनी स्थानके प्रचलन्ती अस्ति ध्येयमस्ति यत् श्रृंखलात्रयस्य प्रतिस् र्धाद्वयं भारतीय क्रीकेट वृन्देनैव विजितमस्ति

इति वार्ता